श्रम मन्त्रालयो ब्रूतखित् दश्मप्रिय सर्वेषु क्षम्भू बृत्यवसरा प्रदत्ता प्रशासनस्ति कोरोना प्रकोप कारणात् मध्यप्रदर्शिय वित्त संकल्पना सत्रं मार्चमासस्य षड्विंशं दिनांकं यावत् स्थगितम्

या कोविड नवदश संक्रमण स्य प्रसार नियंत्रितो भवक्ति ट्वीट् सन्दर्यात्रियानमन्त्रिणा नागरिका समाश्वासिता प्रोक्त जनानां स् स्वास्थ्यं सुनिश्चर्द्ध प्रशासनं सर्वात्मना प्रयतत क्रोरोना रूजा पीडितानां उपचार मेंलग्नानां चिकित्सकानां अन्यक्षी स्वास्थ्य कर्मिणां चापि समन्वित प्रयासा श्रीमोदिना प्रशंसिता

अत्रान्तरञिनावश्यक यात्रापि नैव विधातुं प्रधानमन्त्रिणा जना समुदीरिता जोशी संसद संसद व्यवहारमन्त्री प्रहलाद जोशी व्यज्ञापयत् यत् संसद वित्तीय संकल्पना सत्रस्य काल नैव न्यूनी करिष्यता असौ संसद बहि सन्दर्भ जिज्ञासमानान् वार्ताहरान् समुत्तरति स्म ईरान कोरोना षड्विंशदधिकद्विशतानां जनानां प्रथमसमूहस्य ह्य जैसलमर सम्प्राप्त्यनन्तरं अद्य प्रात ईरानत त्रिपञ्चाशत् जनानां नवसमूहोऽपि जैसलमस्त्रि सैन्य उपचार क्वि सम्प्राप्त

राज्यसभा कोरोना विषाणो प्रसृत दृष्प्रभाव कारणात् जनान् अनावश्यक यात्रां नैव विधात्ं परामूशति प्रशासनम् काल ्रिस्मिन् विमाननां रस्प्रानानां च शुल्कमुक्त आरक्षण परावर्तनं भवर्दिति विषय अिद्य राज्यसभायां परिचर्चा अभूत् सी पी आई सी पी आई एम् इति दलद्वय मपि प्रशासनं न्यवर्ष वत् प्रोक्त च उक्तविषय विचार्य प्रशासनं यथाशीध्रं निर्णयं प्रकाशयत् इति राज्यसभाया शून्यकालखि द्रतगत्या प्रसुतस्य कोरोना विषाणो गंभीर स्थिति विषयमालक्ष्य सम्भाषणावसरआंसदा व्याहरन् यत् संक्रमणमिदं जन जीवनम् अस्तव्यवस्तायितम् चर्चान्तप्रिज्यसभाध्यक्ष एम् वेंकैया नायडु चापि प्रशासनम् विषयर्सिमन् विचारयितुं निरदिशत् एकोनविंशत्युत्तर द्वि सहस्रतमवर्षीयं क्ट्रीय संस्कृत विश्वविद्यालय विधाक्रिम् अद्य राज्यसभया अभ्यप्गतम् एतददृष्टि दर्यात्रिवल्यमानाना त्रयाणा राष्ट्रिय संस्कृत विद्यापीठाना क्ट्रीय संस्कृत विश्व विद्यालयत्वर्त प्रतिष्ठापन वर्तत श्रिवनिमतर्त अभ्यूपगतं विध्यक्रिमवलम्व्य चर्चाकालश्रानव संसाधन विकासमन्त्री रमध्यपोखरियाल निशंक सबलं व्याहरत् यत् संस्कृतसाहित्यं हि भारतस्य महद वैशिष्ट्यं